भारतस्य शीर्ष नेतृभि जगत प्रम्ख राजनैकेश्च तस्यै दिवंगतात्मने शान्ति प्रार्थिता

सुषमा देशस्य प्राक्तन् विदेशमन्त्री भाजपा दलस्य वरिष्ठ नेत्री च श्रीमती सुषमा स्वराज गतरात्रौ पञ्चतां गता तस्या अन्त्योष्टि अद्य नवदिल्लीस्थे लोधी रोड श्मशान भूमौ सञ्जाता इत प्राक् राज्यसभायां तस्यै भावपूर्णा श्रदधाञ्जलिः समर्पितः भारतस्य शीर्ष नेतृभिः जगतः प्रमुख राजनैकेश्च तस्यै दिवंगतात्मने शान्ति प्रार्थिता राष्ट्रपतिना रामनाथ कोविन्देन उपराष्ट्रपतिना एम वेंकैया नायड्ना प्रधानमन्त्रिणा नरेन्द्रमोदिना रक्षामन्त्रिणा राजनाथ सिंहेन भाजपाध्यक्षेण ग़हमन्त्रिणा च अमितशाहेन अथ च कतिपयैः नेतृभिः स्षमा स्वराजस्य निधनम् अन्शोचितम् राष्टपति रामनाथकोविन्द राष्ट्रपतिना रामनाथकोविंदेन जम्मु कश्मीराय विशेष स्तर प्रदान स्वरूप संविधानस्य सप्तत्यधिकत्रिशतान्च्छेदस्य प्रावधानानां अपाकरणं उदघोषितम् अधिसचनेयं विधिन्यायमन्त्रालयेन प्रख्यापिता

राज्यसभा स्थगित राज्यसभाया कार्याचरणं अनिश्चितकालार्थं स्थगितम् सभापति एम वैंकेयानायड् निज समापन वक्तव्ये अकथयत् यत् अस्मिन् सत्रे एकत्रिंशत् विधेयकानि पारितानि तेन प्रोक्तम् यत् सत्रावधौ विधेयकेष् सार्वजनिक महत्वविषयेष् च अष्टत्रिंशत् चर्चा संजाता अस्मिन् सत्रे प्रतिशतं पञ्चोत्तरएकशतमितं कार्य संजातम् यद्धि विगत पञ्चवर्षेष् सर्वाधिकं वर्तते

निक्षेप मिति प्रतिशतं पञ्चदशमलव सप्त पञ्च मितात् अपचीय प्रतिशतं पञ्च दशमलव चत्ःमिता विहिता

राज्यसभा प्रशासनेन राज्यसभाया जम्मू कश्मीर आरक्षण द्वितीय संशोधन विधेयकं अद्य प्रत्यावर्तितम्